ध्यानास्पदमस्ति यत् प्रतिवर्ष विश्व जल दिवस मार्च मासस्य द्वा विंशति दिनांके आमान्यते

तेनोक्तं यन्नायं काल यदा कोरोणा प्रसंगे निश्चिन्ता भूत्वा वयं शिथिला भवाम

सूच्यौषधाभियानस्य चरणेऽस्मिन् षष्ट्यधिकवर्षीयाणां नारिकाणां कृते एवंच पंचचत्वारिंशदधिक वयो वर्गीयाणां गभीरव्याधिप्रपीडितानां कृते सूच्यौषधानि प्रदास्यन्ते

स्वास्थ्यमंत्रालयेन स्पष्टीकृतं यत् राज्यप्रशासनानि स्वास्थ्ययोजनान्तर्गतं सूचिबद्धानां सर्वेषां प्रशासनेतरचिकित्सालयानां कोरोनाटीकाकरण केन्द्ररुपेण उपयोगार्थं क्षमानि भविष्यन्ति

वर्षस्यास्य विषयोऽस्ति विज्ञानं प्रौद्योगिक्या भविष्यम नवाचारश्च शिक्षण कौशलं कार्यप्रभावश्च राष्टियविज्ञानदिवसमुपलक्ष्य उपराष्ट्रपतिना एम वेंकैया नायडू वर्येण वैज्ञानिकसमुदायाय विज्ञानरूचिकरेभ्यश्च वर्धापनानि प्रदत्तानि सूचना प्रसारणमंत्रिणा प्रकाशजावडेकरेण भणितं यत् चन्द्रशेखर वैंकटरमणस्य विज्ञानक्षेत्रे योगदानमनुकरणीयमस्ति श्रीजावड़ेकरेण राष्ट्रनिर्मातृभ्यो वैज्ञानिकभ्य स्वीय वर्धापनानि प्रदत्तानि

स्मिन् प्रक्षेपणे भारत ब्राजील मरीकादेशानां नवदशोपग्रहा सम्मिलिता सन्ति पृथक्करणस्य चतुश्चरणानन्तरं एतेन ब्राजीलस्य सप्तत्रिंशदुत्तरषट्शत किलोग्रामयुतस्य एमेजोनिया एकम् इति प्रमुखोपग्रहस्य प्रक्षेपणं कृतम्